युवमतदातृन् प्रोत्साहयितुं प्रत्येकं वर्ष जनवरी मासस्य पञ्चविंशति दिनांके समायोज्यते अयं दिवस

अपरत देशे संक्रमण स्वस्थ्तामिति अष्ट त्रीणि दशमलवोत्तर षण्णवति प्रतिशतं यावत् विवधिता

भवन्तोऽपि कोरोणासङ्क्रमणं अवसानं गच्छेत् तदर्थम् अस्मभिः साकं स्रक्षाया उपायत्रयं यथावस्थमेव सन्धारयेय्ः कुशाग्रबदधिपरिचायकपरं मुखनासिकाच्छादकं सामाजिकदौर्यान्पालनं पाणिपादप्रक्षालनं च सर्वदैव अवधारयन्त् औषधम् अपि समवधानता अपि

गणतन्त्र दिवस प्रदर्शने भाजमानै राष्ट्रियसैन्य छात्रै राष्ट्रियसेवायोनाया छात्रै सह सम्भाषमाण श्रीमोदी प्रावोचत् यत् यदा तै राजपथे स्वीया जिजीविषाया प्रदर्शनं अन्ष्ठीयते तदा प्रत्येकमपि देशवासी सोत्साही ऊर्जापरिप्लावितश्च भवति तेन सबलं व्याहृतं यत् यदा ते राष्ट्रस्य समृद्धिं कलां संस्कृति परम्परां न्यासञ्च प्रदर्शनयन्ति तदा राष्ट्र गर्वम् अन्भवति गणतन्त्र दिवसावसरे तै राष्ट्रस्य विविधता अन्भूता स्यात्

अस्माभि तानि तानि कार्याणि अवश्यमेव विधेयानि यानि भारतं स्दृढयन्ति प्रधानमन्त्रिणा मोदिना स्पष्टीकृतं यत् भारतम् इत्यनेन आशयो वर्तते सामान्यजनानाम् आशा आकांक्षा परिश्रमश्च

राष्ट्रपते सम्बोधनं सायं सप्तवादने आकाशवाण्या द्रदर्शनस्य च सर्वाभि वाहिभि प्रसारयिष्यते द्रदर्शने प्रसार्यमाणं इदं सम्बोधनं हिन्दीभाषया सहैव आङ्गल टिप्पण संवलितं भविष्यति आकाशवाणी क्षेत्रीय भाषायां इदं सम्बोधनं रात्रौ सार्ध नव वादने प्रसारयिष्यति इति